ते व्यापकनिरीक्षण ं नियन्त्रणं च कुर्य

स अब्रवीत् यत् कार्यक्रमोऽयं अखिल भारतस्य स्वदेशीय कालाकाराणां शिल्पकाराणां च कृते महत्वपूर्णो वर्तते अपि च अयं भारतीय कलाशिल्पयो अभिरामा प्रदर्शिनी अस्ति स न्यगादीत् यत् अनेन कार्यक्रमेण स्थानीय उत्पादानां प्रचारो भवति िवे च तेषां समुचितमूल्यमपि प्राप्यते यत् आत्मनिर्भरभारत निर्माणे महत्त्वपूर्णमस्ति

उत्तरी रेलसेवा क्षेत्रस्य मुख्य क्षेत्र प्रबन्धक साकिब यूस्फवर्य प्रोक्तवान् यत् आदौ द्वे रेलयाने कि प्रवर्तिष्येते तेन अध्यर्थित यत् जनै कोविड संक्रमण निरोद्वं सर्वोपाया परिपालनीया अपि च अनावश्यक यात्रा नैव कुर्यात्